रक्तद्र्गस्य प्राचीरात् राष्ट्रं सम्बोधयता प्रधानमन्त्रिणा जलजीवन मिशन विषये उद्घोषणा विहिता

महाराष्ट्रे जलपूर पीड़िताभ्यां कोलापूर सांगली जनपदाम्यां प्राय पञ्चचत्वारिशत सहस्राधिक ष लक्ष जना सुरक्षित स्थलेष् प्रापिता सन्ति

गतदिने रक्तर्द्गस्य प्राचीरात् सम्पूर्णेंऽपि देशे पेयजल सौविध्यं समेत्य कतिपया महत्वपूर्णोंद्वोषणा विहिता जम्मू कश्मीरस्य जनानाम् आकांक्षां प्रपूथितुं प्रधानमन्त्रिणा प्रतिबद्धता प्रकर्तिता मुख्यरक्षाधिकारिण पदसर्जनार्थम् उद्घोषितम् जनसंख्या विस्फो म् अवरोद्धम् अथ च एक देश एकं च निर्वाचनंम् इत्यस्मिन् विषयेऽपि तेन सबलं व्याह्यतम् श्रीमोदी न्यगदत् यत् प्रशासनं स्वीय द्वितीय कार्यकाले पञ्चवर्षांवधये जनानाम् आकांक्षा स्वप्नं च प्रपूरयित्रम् कार्यमाचरिष्यति प्रधानमन्त्रिणा प्रतिपादितं यत् सप्तत्यधिक त्रिशतानुच्छेदस्य अपाकरणं एकं राष्ट्रं एकं च संविधानं प्रति पदक्षेपो वर्तते प्रधानमन्त्रिणां प्रतिपादितं यत् आगामिष् पञ्चस् वर्षेष् आधारभूत सौविध विकास परियोजनास् शतं लक्षकोरि रुप्यकाणां निवेश विधास्यते

अस्मिन्नेव दिवसे भाजपादलस्य साहसिक नेतृभि अन्तिमोच्छवास गृहीत आसीत अज्ञि बिहारी वाजपेयी वर्येण वारत्रयं प्रधानमन्त्रिरूपेण देशसेवा कृता पञ्चदशोत्तर द्विसहस्रतमे वर्षे असौ भारतस्य सवौंच्च नागरिक सम्मानेन भारतरत्नालंकरणेन सम्मानित आसीत अवसरे अस्मिन् अखिलेऽपि देशे नैके कार्यक्रमा समायोज्यन्ते

तेनोदीरितं यत् भाजपाध्यक्षेण गृहमन्त्रिणा च अमितशाहेन सह मन्त्रिपरिषद विस्तार विषये परिचर्चा भविष्यति

तत्र सहाय्योद्धार कार्याणि सजवं प्रवर्तन्ते

अधिकारिभि सूचितं यत् कृष्णानद्या जलस्तर सांगली नगरे संक चिन्हात् अध जातोऽस्ति

वर्षेडस्मिन् ऊनचत्वारिशदधिक त्रिलक्ष संख्याकै श्रद्धाल्भि हिम निर्मितस्य शिवलिंगस्य दर्शन विहितम् इत पूर्वम् आतंकवाद्याक्रमणस्य आशंकाम् अभिलक्ष्य यात्रावधि षो ज्ञादिनेभ्य न्यूनीकृत आसीत् पूंछ जनपदे ब्रूढा अमरनाथयात्रा अपि शान्तिपूर्णरीत्या सम्पन्ना जाता म्यामार आक्रमणम् म्यामारे जातीयदृशा अल्पसंख्यकै देशस्य पूर्वीये भागे पञ्चास् स्थलेष् विहितै आक्रमणै चतुर्दश जना मृता चत्वार लक्ष्यधिकारिणश्च विल्प्ता सूच्चन्ते